नृतनत्वेन संघटितयोः जम्मुकश्मीर लद्दाखेति केन्द्रशासितप्रदेशयोः उपराज्यपालयोः शपथ ग्रहण समारम्भार्थं सर्वविध सज्जाः प्रकल्पिताः सन्ति आईएनएक्स सञ्चारमाध्यम प्रकरणे दिल्ल्याः एकेन न्यायालयेन कांग्रेस नेता प्राक्तनः केन्द्रीय मन्त्री च पीचिदम्बरम् नवम्बर मासस्य त्रयोदश दिवसं यावत न्यायिक निग्रहणे प्रेषितः

बुडापेस्टे त्रयोविंशतितः अधः आयुवर्गस्य विश्व मल्ल नायक स्पर्धा मालिकायाम् एकषष्टि किलोग्राम भारवर्गीये निर्णायक द्वन्द्वे भारतस्य उदीयमान मल्लेन रवीन्द्रेण रजत पदकम् अधिगतम्

चतुर्दशाधिक द्रिसहस्व तमाब्दात् प्रतिवर्षम् अक्तूबर मासस्य एकत्रिंशद्दिनाङ्क राष्ट्रियैकता दिवसत्वेन परिपाल्यते अथ च सर्वेषां वर्गाणां जनाः एकताये धावनप्रतिस्पर्धायां सहभागित्वं विदधति प्रधानमन्त्री नरेन्द्रमोदी सरदारपटेलाय श्रद्धाव्जलिं समर्पयित् ग्जराते केवाडिया स्थले एकताप्रतिमायाः यात्रां विधास्यति

प्रधानमन्त्री कार्यालयद्वारा प्रसारिते एकस्मिन वक्तव्ये निगदितं यत् श्रीमोदी केवाडियायां प्रविधि प्रर्दशनीस्थलस्य यात्रां विधास्यति अथ च प्राशासनिक सेवायाः प्रशिक्षणाधीनाधिकारिभिः समं सम्भाषिष्यते सद्यः एव प्रसारिते मन की बात इति आकाशवाणी कार्यक्रमे एकताये धावनकार्यक्रमे समधिकसंख्यायां सहभागित्वार्थं प्रधानमन्त्रिणा जनाः समाकारिताः आसन् राष्ट्रियराजधान्यां नवदिल्ल्यां मेजर ध्यानचन्दक्रीडाङ्गणे गृहमन्त्री अमितशाहः अद्य प्रातः दशकलोत्तरसप्तवादने ध्वजप्रदर्शनपुरस्सरमु एकताये कार्यक्रमस्य शुभारम्भं विधास्यति

लेहस्थे सिन्ध संस्कृत केन्द्रे लद्दाखस्य उपराज्यपालत्वेन राधाकृष्ण माथुरः शपथं प्रहीष्यति असौ जम्मू कश्मीरोच्चन्यायालस्य मुख्य न्यायाधीशया गीता मित्तलेन पदगोपनीयतायै शपथं ग्राहयिष्यते अनन्तरं जम्मूकश्मीरस्य उपराज्यपालत्वेन गिरिश चन्द्र मूर्म अनया श्रीनगरे पद गोपनीयतायै शपथं ग्राहयिष्यते

एतद् विषयको निर्णयः दलस्य राष्ट्रियाध्यक्षस्य मुख्यमन्त्रिणथ नीतीश कुमारस्य आध्यक्ष्ये नुतनत्वेन संघटितस्य संयुक्त जनता दलीय राष्ट्रिय परिषदः सम्मेलने द्वाे नवदिल्ल्यां गृहीतः